प्रशासनेन कोरोणा महामार्यया मृत पत्रकाराणां कुटुम्बकेभ्य पंचलक्षरुप्यकाणां वित्तीय सहायताया घोषणा कृता अद्य राज्यसभायां ब्रिटेनदेशे नस्लवाद विषये अश्विन वैष्णवस्य प्रश्नस्य प्रत्युत्तरे तेन निष्पादितं यत् सर्वकारस्य अस्मिन् विषये दृष्टि अस्ति शिक्षामन्त्री उक्तवान् यत् कोरोणामहामारीकाले सप्तविंशतिः लक्षं शिक्षकाः प्रशिक्षिताः महाराष्ट्र पंजाब कर्नाटक ग्जरात तमिलनाड्राज्येष् कोरोणामहामार्याः प्रकरणेष् वृद्धिः जायमाना अस्ति तमिलनाडुकेरलराज्ययोः मुख्यमन्त्रिणौ विधासभानिर्वाचनेभ्यः स्वनामाङ्कने परिपूरितवन्तौ

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

वित्तमन्त्री निर्मला सीतारमणः अद्य लोकसभायाम् उक्तवती यत् वस्तुसेवाकरपरिषदः द्वारा अपि अस्य अनुमोदनं न कृतम् अस्ति सा अवदत् यत् परिषद उचिते समये पेट्रोलियम उत्पादानां वस्तुसेवाकरप्रणात्याम् आनयनस्य विषये विचारं कर्त् शक्नोति तत्रैव प्रकप्रश्नान् उत्तरन् वित्तराज्यमन्त्री अनुरागठाकृरः अवदत् यत् केन्द्रप्रशासनं राज्यप्रशासनानि च मिलित्वा भूतैलानां मृत्यान् न्यनीकत्त् प्रयत्नान् कुर्युः तेन राज्यप्रशासनानि अपि एतेष् उत्पादेष् करान् न्यूनीकर्त् प्रार्थितानि लोकसभा पत्रकार प्रशासनेन कोरोणा महामार्यया मृत पत्रकाराणां कृटम्बकेभ्यः पंचलक्षरुप्यकाणां वित्तीय सहायताया घोषणा कृता लोकसभायां सूचना प्रसारण मन्त्रिणा प्रकाश जावड़ेकरेण प्रतिपादितं यत् मन्त्रालयेन पत्रकार कल्याण योजनान्तर्गतं पत्रकाराणां वित्तीय सहायतायै एकं विशेषाभियानं प्रचालितम् सूचनामन्त्री प्रोक्तवान् यत् पत्रकाराणां कृते महामारीं रोद्ध् दिंनिर्देशा अपि प्रसारिता सन्ति

अद्य राज्यसभायां ब्रिटेनदेशे नस्लवाद विषये अश्विन वैष्णवस्य प्रश्नस्य प्रत्युत्तरे तेन निष्पादितं यत् सर्वकारस्य अस्मिन् विषये दृष्टि अस्ति सहैव आवश्यकता समये कठोराचरणस्य प्रयोग भविष्यति तेन अप्रे भणितं यत् भारतदेश महात्मागांधिन भूमि वर्तते एतदर्थं नस्लवादस्य बहिष्कारो भवेत् विशेषतया येष् देशेष् भारतीया निवसन्ति अवधेयास्पदं वर्तते यत् ऑक्सफोर्ड विश्वविद्यालयस्य छात्रा रश्मिसांवतं प्रति महाविद्यालयात् निष्कासनाय आह्वानं प्रदत्तम् आसीत् शिक्षामन्त्री शिक्षामन्त्री उक्तवान् यत् कोरोणामहामारीकाले सप्नविंशतिः लक्षं शिक्षकाः प्रशिक्षिताः सर्वकारः अद्य उक्तवान् यत् कोरोणामहामारीकाले त्रिंशत् लक्षं शिक्षकाः प्रशिक्षणकार्यक्रमार्थं पञ्जीकरणं कारितवन्तः आसन् तेष् सप्नविंशतिः लक्षं शिक्षकाः प्रशिक्षणं प्राप्तवन्तः एकस्य अन्य प्रश्नस्य उत्तरं यच्छन् श्रीमान् निश्शङ्कः उक्तवान् यत् ये शिक्षामहाविद्यालयाः बीएड् इति कार्यक्रमस्य मानकान् न प्रयन्ति तान् विरुध्य सर्वकारः पदक्षेपान् उत्थापयति सः ज्ञापितवान् यत् गतेष् केषचित् वर्षेष् चत्ष्षष्टिसहस्रोत्तर षष्टिलक्षं शिक्षकाः प्रशिक्षिताः सर्वकारेण शिक्षकानां प्रशिक्षणाय सार्धद्विसहस्रं कोटिरुप्यकाणि वितरितानि

आईपीओ इत्यनेन जीवन बीमा निगमे निवेशः वर्धितः भविष्यति सः अवदत् यत् आईपीओ मध्ये वर्तमानधारकानां भागस्य विषये अनन्तर निर्णयः भविष्यति श्रीमान् ठाकुरः अवदत् यत् आईपीओद्वारा देशस्य निगमस्य धारकानां लाभः भविष्यति

तानि च राज्यानि महाराष्ट्र तमिलनाड़ पंजाब मध्यप्रदेश दिल्ली ग्जरात कर्नाटक हरियाणाः

स्वास्थ्य मन्त्रालयेन निष्पादितम् यत् विगते अहोरात्रे चत्वारिंशत्सहस्राधिक एकलक्षं जनै कोरोना प्रतिरोधि सूच्यौषधं सम्प्राप्तम् देशे कोरोना महामार्या स्वस्थताप्रतिशतता अधुना षण्णवति दशमलव षड् अष्टमिता अंकिता विगतासु चतुर्विंशतिहोरासु सप्तसहस्र जना स्वस्थीभूता विश्व उपभोक्तृ दिवस अद्य विश्व उपभोक्तृ अधिकार दिवस अस्ति अयं दिवस प्रतिवर्ष मार्चमासस्य पंचदशदिनांके उपभोक्तृणाम् अधिकाराय वैश्विक जागरूकता संवर्धनाय च आमन्यते अवसरेऽस्मिन् उपभोक्तृ मन्त्रिणा पीयूष गोयलेन जनेभ्य शुभकामना प्रदत्ता एकस्मिन् ट्वीटालेखे असौ प्रोक्तवान् यत् नरेन्द्रमोदिनेतृत्वे उपभोक्तार सुरक्षिता संरक्षिताश्च सन्ति

अस्य अधिनियमस्य उद्देश्यं खाद्यप्रौद्योगिक उद्यमशीलता प्रबन्धनसंस्थानानां राष्ट्रियमहत्त्वत्वेन निर्माणम् अस्ति एतेष् संस्थानेष् कृण्डलीस्थितं संस्थानं तंजाव्रे च स्थितं संस्थानं इति सन्ति जावडेकर जलवायु परिवर्तनम् सूचना प्रसारण मन्त्री प्रकाश जावडेकर उक्तवान् यत् विश्वं जलवाय् परिवर्तनस्य प्रतिकूल प्रभावानां प्रतिरोधनाय भारतस्य नेतृत्वं स्वीकृतवदस्ति अद्य राज्यसभायाम् सः अवदत् यत् देशः आगामि द्विवर्षपर्यन्तं पंचसप्तत्यधिकैकशतम् गीगावॉट सौर उर्जाया समर्जनलक्ष्यं प्रति प्रतिबद्धः अस्ति तेनोक्तं यत् प्राविधिक समितय महत्वपूर्णानि संस्थानानि च जलवाय् परिवर्तन विषये अध्ययनरतानि सन्ति

राज्यसभायां लिखितोत्तरे रक्षामन्त्री राजनाथसिंहः अकथयत् अध्नावधि द्विचत्वारिंशत् राजमार्गाणां निर्माणं पूर्णं जातम् अस्ति

तत्रैव केरले अपि नामांकनप्रक्रिया तीव्रा अस्ति मुख्यमन्त्रिणा पिनरई विजयनेन धर्मडोमत स्व नामाकन पत्रम् पूरितम् प्रत्याशिन श्क्रवासरपर्यन्तम् एव नामांकनपत्र सम्पूरयिष्यन्ते नामांकनपत्राणां परीक्षणं शनिवासरें भविष्यति